केन्द्रात् प्राप्तस्य सूच्यौषधस्य न्यूनातिन्यूनं प्रतिशतं सप्तति मितः भागः द्वितीय सूच्यौषधरूपेण रक्षणीयः स्वास्थ्य मन्त्रालयस्य अनुसारि देशे कोविड् संक्रमण प्रकरणेषु मृत्युमितौ च अपचितिः अभवत् गत दिने षट् पश्चाशत् सहस्राधिक त्रि लक्षमिताः कोविड् ऊनविंशति रोगिणः स्वस्थीभूताः

नगालैंड शासनेन अपि मे मासस्य चतुर्दश दिनाड्कात् राज्यव्यापि पूर्ण पिधानाय घोषणा कृता

अपि च रूस देशस्य कजान नगरे एकस्मिन् विद्यालये गोलिका वर्षणम् अष्ट जनाः मृताः प्रियाः श्रोतारः कोरोणा महामारीं विरुध्य देश ऐक्य भावनया युध्यते भवन्तः अपि यथायोग्यं सूच्यौषधं स्वीकृत्य अस्माभि सह सुरक्षाया उपायत्रयस्य सड्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदूरतां परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु अथ वार्ताः विस्तरेण केन्द्रेण राज्य केन्द्र शासित प्रदेशाः निर्दिष्टाः यत् ते द्वितीय कोविड् सूच्यौषधाय प्रतीक्षारतेभ्यः जनेभ्यः प्राथमिकतां दद्युः केन्द्रीयः स्वास्थ्य सचिवः राजेश भूषणः कोविड् प्रबन्धनाय प्राप्त अधिकार समूहस्य अध्यक्षः डॉक्टर् आर् एस् शर्मा च गतदिने राज्य केन्द्र शासित प्रदेशानां स्वास्थ्य सचिवैः सह कोविड् सूच्यौषध स्थितेः समीक्षां कृतवन्तौ श्री भूषणः अवदत् यत् केन्द्रात् प्राप्तस्य सूच्यौषधस्य न्यूनातिन्यूनं प्रतिशतं सप्तति मितः भागः द्वितीय सूच्यौषधरूपेण रक्षणीयः पूर्वोत्तरीय क्षेत्र विकास राज्यमन्त्री डॉक्टर् जितेन्द्र सिंहः अवदत् यत् तस्य मन्वालयः कोविड ऊनविंशति महामार्याः द्वितीयां लहरीं प्रभावि रूपेण सम्मुखीकत्तुं सर्वेषाम् अपि अष्टानां पूर्वोत्तरीय राज्यानां सर्वात्मना सहायतां करोति डॉक्टर् सिंहः कोविड् महामार्याः सम्मुखीकरणाय विहिताः सज्ञाः समीक्षितुं मुख्यसचिवैः स्वास्थ्य सचिवैः केन्द्र शासनस्य अधिकारिभिः च सह एकं समीक्षणोपवेशनम् आकारितवान् देशे गत दिने षट् पञ्चाशत् सहस्राधिक त्रि लक्षमिताः कोविड् ऊनविंशति रोगिणः स्वस्थीभूताः स्वास्थ्य मन्त्रालयस्य अनुसारि कोविड् संक्रमण प्रकरणेषु मृत्युमितौ च शनैः शनैः अपचितिः भवति पर न्तु अधुना अपि कतिपयेषु राज्येषु केन्द्र शासित प्रदेशोषु च संकमण स्थतिः गंभीरा सूच्यते कोविड् महामारीम् अभिलक्ष्य तेलंगाना राज्ये अद्यप्रभृति दृश दिवसावधये पूर्ण पिधानं भविष्यति तत्रत्य शासनेन एतद्विषयिणी घोषणा कृता अपरतः नगालैंड शासनेन अपि मे मासस्य चतुर्दश दिनाड्कात् राज्यव्यापि पूर्ण पिधानाय घोषणा कृता प्रधानमन्त्री नरेन्द्र मोदी कोविड् महामार्यां सहयोगाय भूटानस्य प्रधानमन्त्रिणं डॉक्टर् लोटे शेरिगं प्रति आभारः प्रकाशितः उभौ अपि नेतारौ गतदिने दूरभाषेण भाषितवन्तौ वाणिज्य उद्योग मन्त्री पीयूष गोयलः निर्यात संवर्धन परिषदा सह गतदिने विचारणां कृतवान् अन्त्र उपवेशने अन्तार्राष्ट्रिय व्यापार संबद्ध विषयेषु विस्तरेण चर्चा जाता श्री गोयलः अस्यां कठिन परिस्थितौ उत्तम प्रदर्शनाय निर्यातकान् अभिनन्दितवान् रूस देशस्य कजान नगरे एकस्मिन् विद्यालये गोलिका वर्षण घटनायाम् अष्ट जनाः मृताः नैके च अन्ये व्रणिताः अभवन् एषा घटना ततारिस्ताने जाता यत्र मुस्लिमाः बाहुल्येन वसन्ति इति वार्ताः